अना विध्यक्रित त्रितलाकोच्चारणम् असंवैधानिकं दण्डात्मकं च भविष्यति

तत्रत्यप्त राष्ट्रपतिना अदामा बारो वर्येण श्रीकोविन्दस्य बंजुल विमानपत्तनभिव्यं स्वागतं कृतमा कस्यापि भारतीय राष्ट्रपत प्रेथमख्यि गाम्बिया यात्रा वर्तत अस्माक वार्ताहरणिस्चित यत् अद्य श्रीकोविन्द गाम्बिया दश्मिय राष्ट्रपतिना सह प्रतिनिधि मण्डल स्तरीयं सम्भाषणं करिष्यति

रस्त्रिमन्त्रालयस्य विज्ञप्तौ प्रतिपादितं यत् रस्त्विभागस्य आञ्चलिक कार्यालयै कर्मकराणां कार्यनिष्पादन समीक्षायै निर्देशा प्रख्यापिता वर्तन्त सार्वजनिकहितं निध्याय पूर्वमपि एवमद्व कार्यनिष्पादन समीक्षा रत्त्विभाग िक्रितासीत्

मन्त्रिमंडलस्य नियुक्ति समित्या निर्णयोऽयं स्वीकृत

नवदिल्याम् आयोजितस्पर्धायां तया सोमवासर प्रथमं स्वर्णपदकं विजितम्